नीट इति राष्ट्रिय पात्रता सह प्रवेश परीक्षा आगामिनः ऑगस्ट मासस्य प्रथमे दिनांके समायोजयिष्यते ग्जराते अहमदाबाद स्थे नरेन्द्रमोदि क्रीडा प्रांगणे गतरात्रौ सम्पन्ने प्रथमे विंशति प्रतिविंशति क्षेप चक्रीये क्रिकेट द्रन्द्रे इंग्लैण्डेन भारतम् अष्टभिः क्रीडकैः पराजितम्

भवन्तोऽपि अस्माभि सह सरक्षाया उपाय त्रयस्य सङ्कल्प स्वीकुर्वन्तु म्खावरकं सन्धारयन्त् सामाजिक दूरतां परि पालयन्तु पाणि पाद च यथा समय प्रक्षालयन्त् औषधम् अपि सावधानता अपि

एभिः देशैः गतदिने समायोजिते प्रथमे शिखरोप वेशने संयुक्त तया कथितं यत्ते सर्वमान्य नियमानाम् अनुपालनं परस्पर देशेषु मुक्त गमनागमनं विवादानां शान्तिपूर्णं समाधानं लोकतान्त्रिकं मूल्यजातं क्षेत्रीयम् अखण्डत्वं च समर्थयन्ति कोविड समेताना समेषामपि साम्प्रतिक समाह्वानाना संमुखीकरणे चत्र्देशाना नेतृभिः परस्पर सहयोगार्थं प्रतिबद्धता पुनः व्यक्तीकृता

गतदिवसे विश्व आयुर्वेद महोत्सवं सम्बोधयन् सः कथितवान् यत् अस्याः पारम्परिक चिकित्सा पद्धतेः प्रचाराय लोकप्रियता सम्पादनाय च साम्प्रतिकः कालः सर्वथा उपयुक्तो विद्यते श्रीमोदी उक्तवान् यल्लोकाः रोग प्रतिरोधक क्षमतायाः संवर्धने आयुर्वेदस्य महत्वं सम्प्रति सुतरां नितराम् अन्भवन्ति

जम्मू स्थः अस्मदीयो वार्ताहरो विज्ञापयति यद एषः रूप्यक राशिः तत्र एकस्मिन कृषि क्षेत्रे गर्त्ते गोपितः आसीत् एतद विषये सूचना च नातिपूर्व निगृहीतेन रोमेश कुमार नाम्ना अवैध मादक द्रव्य व्यापारिणा प्रदत्ता आसीत्

अन्तः स्नातक स्तरे समायोज्या इयं परीक्षा एकादशस् भाषास् भविष्यति

क्रिकेट् ग्जराते अहमदाबाद स्थे नरेन्द्रमोदि क्रीडा प्रांगणे गतरात्रौ सम्पन्ने प्रथमे विंशति प्रतिविंशति क्षेप चक्रीये क्रिकेट द्रन्द्रे इंग्लैण्डेन भारतम् अष्टभिः क्रीडकैः पराजितम्